सहब प्र शिलौंगस्थे निग्रहीम्स इत्याख्ये आयुर्विज्ञान संस्थाने सार्ध सप्त सहस्रतमं जनौषधिकेन्द्रमपि समुद्घाटयिष्यति अवसरेऽस्मिन् श्रीमोदी एतद् योजनाया लाभार्थिभि संभाषिष्यतेक्षेत्रेऽस्मिन् उत्कृष्टयोगप्रदायिभ्य प्रस्कारान् च वितरिष्यति प्रधानमन्त्री पे चर्चा परीक्षा पे चर्चा इति वार्षिक कार्यक्रमस्याऽन्तर्गतं प्रधानमन्त्री मासेऽस्मिन् दृश्यश्रव्यप्रणाल्या विद्यालयीय परीक्षार्थिभि शिक्षक अभिभावकृष्ण्यि सार्ध संभाषिष्यते संप्रति आयोजनेऽस्मिन् भागग्रहणेच्छ्कानां माई गॅव् इत्येतन्मंचमाध्यमेन पंजीकरणप्रक्रिया मासस्यास्य चत्र्दश दिनांक यावदन्वर्तिष्यते अत्रावसरेविजयित्वेन अवचिता द्विसहस्रप्रायाश्छात्र शिक्षकाभिभावका विशिष्टप्रस्कारप्रि सत्करिष्यन्ते

पूर्व कदाचित् ममता बर्जिया निकटतरवर्त्तिष् नेतृष् अन्यतम शुभेन्दु अधिकारी कतिपय दिवस पूर्वमेव भाजपा दलं प्रादिशत् भाजपादलेन भावि विधानसभा निर्वाचनेभ्य स्वीय षट्पंचाशत् प्रत्याशिनां नामसूची गतदिवसे प्रकाशिता

दलमेतद् राज्ये वामदल सार्ध संय्ज्य प्रतिस्पर्धमान विद्यते तमिलनाड़ मतदानयन्त्राणि तमिनाडो मुख्यनिर्वाचनाधिकारी सत्यव्रत साहू समाश्वासयत् यन्निर्वाचनेषु उपयोज्यानि मतदानयन्त्राणि सर्वथा सुरक्षितानि सन्तिअपि च एष्वाधृतंभारतीय लोकतन्त्रं पूर्णत परिरक्षितं वेदितव्यम् स गतदिवसे चेन्नय्यां प्रसारभारत्या समायोजितस्य कार्यक्रमस्य औपसंहारिकं सत्रं समुद्वोधयति स्म

अनेन विजयेन सहक्ष भारतीयदलेन विश्व क्रिकेट् निकष क्रीडा मालिकाया निर्णायक चक्रे प्रवेशोऽपि संप्राप्त किंच अन्ताराष्ट्रिय क्रिकेट् निकष क्रीडक वृन्दानां विश्वमानांक तालिकायामपि सम्प्रति भारतं न्यूजीलप्रि न्यक्कृत्य शीर्ष स्थानम् प्राप्रवत्